एतदर्थ निवेद्यते यत् असावधानतां मा व्यवहरन्त् अष्टादश वर्षात् अधिकवयोभिः सर्वैः जनैः सूच्यौषध स्वीकरणीयम्

वार्ता विस्तरेण रिजर्वबैंक ऑफ इंडिया रिजर्वबैंक इति केन्द्रीयवितकोषेण आपात स्वास्थ्य सेवानां सरलीकरणार्थं पञ्चाशत्सहस्रकोटिमितात्मिका सावधि तरलता सौविध्य योजना प्रस्ताविता रिजर्वबैंकस्य प्रमखेण भणितं यत कोरोना संक्रमणेन समत्पन्नास परिस्थितिष वयं सन्नदधा एवञ्च वर्तमानपरिस्थितिष् सर्वसम्भवा उपाया अपि समीक्ष्यन्ते विभिन्न सञ्चार तन्त्र माध्यमेन तेन प्रतिपादितं यत् वृध्द आर्थिक स्थिते वितीयापणस्य स्थितेश्च सतत मुल्यांकनाधारे आपात स्वास्थ्य सेवानां सरलीकरणार्थ पञ्चाशत्सहस्रकोटिमितात्मिका सावधि तरलता सौविध्य योजना केंद्रीय वित्त कोषेण प्रस्तयते एतदतिरिच्य देशे कोविड सम्बध्द स्वास्थ्य सौविध्येष तींव्रताप्रदानाय वर्तमान प्रतिशताधारे त्रिवर्षम यावत्पञ्चाशत सहस्रकोटिरूप्यकाणाम ऋणसेवा प्रदास्यते श्रीदासेन प्रतिपादित यत अस्या योजनाया अंतर्गत वितकोषा सृच्यौषधं समेत्य नैकानां उत्पादानां कते संस्थाभ्य ऋणसहायता प्रदात ं शक्नुवन्ति श्रीदासेन निगदित यत उपभोक्ता सुचकांकाधारे मुद्रास्फीति संवर्ध्य मार्चमासे पञ्चदशदशमलवोत्तर पञ्च प्रतिशन्मिता सञ्जाता

न्यायालयेन मम्बई उच्च न्यायालयस्य निर्णयं परिवर महाराष्ट्रे शासकीय वृत्यवसरेष् शिक्षासंस्थाष् प्रवेशाय च मराठा समुदायस्य कते आरक्षण व्यवस्था समाप्ता कता

न्यायालयेन स्वीयनिर्णये स्पष्टीकत यत एतादृश्य विशेषा परिस्थितय न सन्ति यच्चान्तर्गत मराठा वर्गाय समाजिक आर्थिकाधारे च पंचाँशत्प्रतिशत सीमाधिक आरक्षण प्रदधात न्यायलयेन प्रतिपादितं यत गायकवाड़समित्या उच्चन्यायालयेन च उभाभ्यमपि एतादृशं किमपि कारणं न प्रस्त्तं यदन्तर्गतम् आरक्षण व्यवस्था सम्चिता परिदृश्यते

सहैव अध्ना कोरोनामहामार्या स्वस्थतामिति संवर्ध्य दवयाशीति दशमलव दवि त्रिमिता अंकिता विगते अहोरात्रे अष्टत्रिंशत्सहस्राधिक त्रिलक्षजना स्वस्थीभूय गृहं प्रत्यागताः

राजधानी कोविड राजधान्यां देहल्यां कोविड नवदश महामार्या स्वस्थताप्रतिशतता साम्प्रतं प्रवध्य एकनवति दशमलव द्वि त्रि मिता पञ्जीकता तत्रैव संक्रमिताना प्रतिशतता अपचीय षड्विंशति दशमलव सप्त त्रि मिता संवत्ता हयः त्रिपञ्चाशदधिकनवशताधिक नवदशसहस्रजना संक्रमिता अभूवन् सहैवअष्टत्रिंशदधिकत्रि शतं जना कालकवलिता जाता बिहारलॉकडाउन बिहारसर्वकारेण कोरोनाया दुष्प्रभावं रोद्धुम् अप्रैलमासस्य पंचदशदिनांकपर्यन्तं राज्ये पूर्णपिधानस्य आदेश प्रदत्त प्रदत्त दिङ्निर्देशान्सारं राज्ये आवश्यकीयानां वस्तूनां गमनागमने व्यवधानं नैव अविष्यति अपि च पूजास्थानानि धार्मिकायोजनानि च न प्रचलति

इति वार्ता